भारत पिधानम् अवलम्ब्य केन्द्रसर्वकारेण सर्वे केन्द्रशासितप्रदेशाः प्रदेशाथ अधिसूचिताः यत् सुरक्षा प्रबन्धनं सुदृढं भूयात् यूकेदेशः विश्वस्य प्रथम देशत्वेन कोविड् नवदशसूच्यौषधम् अद्य जनेभ्यः सम्पलब्धं कारयिष्यति कोरोनात राष्ट्रिया स्वस्थता मिति अपचीय चत्र्णवति दशमलव चत् पंच परिमिता समंकिता प्रधानमंत्री नरेंद्र मोदी ह्यः न्यगादीत् यत् प्रशासनं लघ्नगराणां आत्मनिर्भर भारतस्य केन्द्रत्वेन विनिर्माणे बलं यच्छति भारतम् ऑस्ट्रलिया देशं च अन्तरा प्रचाल्यमानाया विंशतिप्रतिविंशति क्रीकेटक्रीडाया अन्तिमा क्रीडा अद्य सिडनी क्रीड़ाङ्गणे भविता

आईएमसी विंशतिः विंशतिः इति सम्मेलनं डीटीसीओए इति द्वारा आयोज्यते आयष योग मोरारी जी देसाई राष्ट्रिय योग संस्थानम अन्तर्जालीय शिक्षणस्य कृते नवीनानां सम्प्रयोगाणां सिद्धान्तान सज्जीकरोति अभिक्षमतावृद्धिसोपानानां निर्माणावश्यकता नितरां शिक्षणे प्रविधेः वृद्धिः इति कारणात् वर्तते अधुना एतादृशानां कक्षाणां स्थापनं करिष्यते यतः योगस्य कक्ष्याः अन्तर्जालद्वारा सम्यक् रूपेण सञ्चालिताः भविष्यन्ति भारत पिधानम् भारत पिधानम् अवलम्ब्य केन्द्रसर्वकारेण सर्वे केन्द्रशासितप्रदेशाः प्रदेशाध अधिसूचिताः यत् सरक्षा प्रबन्धनं सुदृढं भूयात् येन कृषक समृहैः क्रियमाणं भारत पिधानम इति अस्य उपरि सम्यक निरीक्षणं भवेत अवधेयास्पदं वर्तते यत कृषकाः नवीनकृषि विधेयकस्य विरूद्व विरोधप्रदर्शनं समाचरन्ति तदंगत्वेन अद्य कृषकैः एकादशवादनतः त्रिवादनं यावत् भारत पिधानम् आहतं वर्तते

यूक बिक्सीन यूकेदेशः विश्वस्य प्रथम देशत्वेन कोविड् नवदशसूच्यौषधम् अद्य जनेभ्यः समुपलब्धं कारयिष्यति प्रारम्भिकस्तरे सूच्यौषधं चिकित्सालयेष् समुपलब्धं भविष्यति अनन्तरम इद निजी चिकित्सालयानां कृते समुपलब्धं कारयिष्यते

आगराया मैट्रोपरियोजना अस्यैव संकल्पस्य एकं उदाहरणमस्ति प्रधानमंत्री द्यः आगरानगरे मैट्रोपरियोजनाया निर्माणकार्यस्य शुमारम्भं व्यदधात्

निगडितेष् आतङ्कवादिष् द्वौ पंजाबत त्रयश्च कश्मीरक्षेत्रात् वर्तन्ते